प्रधानमन्त्रिणा निर्णयोऽयमैतिहासिक प्रोक्त

एतेषाम् अन्तर्गतं प्रोत्साहनस्य लाभ प्राप्त समवाया प्रतिशतं द्वाविंशति परिमिते आयकरस्य विकल्पं स्वीकर्त् शक्न्वन्ति गोवा प्रदेशे जी एस टी परिषद सप्तत्रिंशे उपवेशने वार्ताहरै सह सम्भाषणावसरे वित्तमन्त्रि वर्यया स्वदेशीय नूतन विनिर्माण समवायेभ्य निगमित कर अपसारणस्योद्धोषणापि विहिता तयोदीरितं यत् अधिनियमेऽस्मिन् ब्रेमपि प्रावधानं वर्तते यद् वर्षेऽस्मिन् अक्टूबर प्रथमात पश्चात् स्थापिता नूतन समवाया केवलं प्रतिशतं पञ्चदश परिमितम् आयकरं प्रदास्यन्ति येन विनिर्माणे नूतन निवेशो भविष्यति वित्तमन्त्रिणा निगमित सामाजिक दायित्वे प्रतिशतं द्वि मित व्यय विवर्धनस्य घोषणापि विहिता विषयमम् सन्दृभ्य प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना भणितं यत् एतस्मात् मेक जि डिया कार्यक्रम अतोऽपि सुदृढो भविष्यति वृत्तेरवसराश्चापि वर्धिष्यन्ते नागरिकाश्च लाभान्विता भविष्यन्ति

यात्रावसरे असौ ह्य्स्टननगरं न्यूयॉर्कनगरं च गमिष्यति अस्य मासस्य सप्तविंशे दिनांके असौ संयुक्तराष्ट्र महासभां सम्बोधयिष्यति विदेश सचिव विजयगोखले नवदिल्ल्यां वार्ताहरान् प्रत्यपादयत् यत् प्रधानमन्त्री श्रीनरेन्द्रमोदी सितम्बर मासस्य द्वाविंशे दिनांके ह्य्स्टन मध्ये भारतीय सम्दायस्य हाउडी मोदी त्याख्यं कार्यक्रमं सम्बोधयिष्यति राष्ट्रपति डोनाल्ड ट्रम्पश्चापि कार्यक्रमेऽस्मिन् सहभागं करिष्यति भारतं महात्मागान्धिन सार्धैक शत तम्या जयन्त्या अवसरे सितम्बर चत्र्विंश्यां संयुक्तराष्ट्रे विशिष्ट कार्यक्रमम् आयोजयिष्यति अस्मिन्नवसरे संयुक्त राष्ट्र महासचिवमतिरिच्य कोरियाया राष्ट्रपति सिंगाप्र बांग्लादेश जमैका देशानां प्रधानमन्त्रिभि सहिता भूरिदेशानां प्रमुखश्चापि प्रधानमन्त्रिणा श्रीमोदिना सह भविष्यन्ति